विंशति प्रतिविंशति क्षेप चक्राणां क्रिकेट् क्रीडा मालिकायां भारतेन वेस्ट इण्डीज दलं सप्त षष्ट्या धावनांकै पराजितम्

एतच्चरणान्तर्गत रांची रामगढ़ हजारीबाग कोडरमा चतरा गिरीडीह सरायकेला खरसावां इत्याख्येष् अष्टस् जनपदेष् मतदानानि प्रात सप्तवादनत प्रवर्तिष्यन्ते

याचिकायामेतस्याम् उक्त घटनाया विशिष्टान्वीक्षक वृन्द द्वारा स्वतंत्रतया अन्वीक्षणम अभियाचितमस्ति

स्थानीय समयानुसारं प्रात सप्तवादनत रात्रौ दशवादनं यावत् तत्र मतदानानि अनुष्ठास्यन्ते निर्वाचनमिदं ब्रेक्जिट इति यूरोपीय संघात् ब्रिटेनस्य पृथग्भाव विषयम् अधिकृत्य तत्र वर्ष चतुष्टयाद अनुवर्तमानं गतिरोधं समापयित् समाहतमासीत्

पाकिस्तानस्य आतंक रोधि न्यायालयेन गतदिवसे हाफिज सईद तत्सम्बन्धि त्रयं च आतंकवादिभ्य आर्थिक साहाय्य प्रदानार्थम अरोपित्वेन संघृष्टे क्रिकेट विंशति प्रतिविंशति क्षेप चक्राणां क्रिकेट क्रीडा मालिकायां ह्यो मुम्बय्यां वानखेड़े क्रीडांगणे समायोजिते तृतीये अन्तिमे च द्रन्द्रे भारतेन वेस्ट इण्डीज दलं सप्त षष्ट्या धावनांकै पराजितम्